प्रधानमन्त्री श्रीनरेन्द्रमोदी न्यगादीत् यत् दिल्ली कटरा वंदे भारत एक्सप्रैस रेलयानस्य आरम्भ वैष्णो मात् श्रद्धाल्जनानां कृते नवरात्रि पर्वण उपहार वर्तते

वंदे भारत अमितशाह गृहमन्त्री अमितशाह अद्य दिल्ली कटरा वन्दे भारत एक्सप्रेस इति रेलयानं हरित ध्वजं प्रदर्श्य प्रारम्भं अकरोत् अस्मिन् अवसरे तेन प्रोक्तम् यत् जम्मू कश्मीरस्य विकासाय अस्य रेलयानस्य आरम्भ उपहारो वर्तते अस्मात् कारणात् धार्मिक पर्यटनस्य संवर्धनं भविष्यति तेन एतदपि प्रोक्तम् यत् सप्तत्यधिकत्रिशतन्च्छेदस्य प्रावधानं राज्यस्य विकासे बाधा आसीत् इदानीं आगामि दशवर्षेष् जम्मू कश्मीर देशस्य सर्वाधिक विकासशीलराज्यं भविष्यति अनेन रेलयानेन दिल्ली कटरा क्षेत्रयो मध्ये यात्रा अष्टहोरात्मिका भविष्यति यात्रिणां कृते अस्य रेलयानस्य आरम्भ शनिवासरत भविष्यति वंदे भारत पीय ्षगोयल रेलयानस्य श्भारंभावसरे रेलमंत्री पीयूषगोयल अवादीत् यत् द्वाविंशत्यधिकद्विसहस्रतमवर्षस्य अगस्तमासस्य पञ्चदश दिनांक यावत् रेलविभाग सम्पूर्णदेशं कश्मीरत कुन्याकुमारी पर्यन्त मेलिष्यति स्वास्थ्य परिवार कल्याण मंत्री डॉक्टर हर्षवर्धन अपि अवसरेऽस्मिन् उपस्थित अवर्तत प्रधानमन्त्री श्रीनरेन्द्रमोदी न्यगादीत् यत् दिल्ली कटरा वंदे भारत एक्सप्रैस रेलयानस्य आरम्भ वैष्णो मात् श्रद्धाल्जनानां कृते नवरात्रि पर्वण उपहार वर्तते तेन एतदपि प्रोक्तम् यत् अनेन सम्पर्केण आध्यात्मिक पर्यटने वृद्धि भविष्यति बिहार ऋतुविज्ञानविभागेन बिहारस्य वैशाली समस्तीप्र बेग्सराय खगरीया चेति जनपदेष् आगामि अहोरात्रद्वयं यावत् प्रबल वृष्टि संचेतिताऽस्ति राज्ये जलौघेन द्वाविंशति लक्षाधिकजना प्रभाविता सन्ति इदानीं यावत् सप्तषष्टि जना मृता सूच्यन्ते राज्य प्रशासनेन च प्रत्येकं मृतकानां परिजनेभ्य चत्र्लक्षरूप्यकाणां अन्ग्रहराशि उद्घोषित बांग्लादेश बांग्लादेशस्य प्रधानमन्त्री शेख हसीना चतुर्दिवसीय भारतयात्रार्थं दिल्लीं सम्प्राप्तवती अद्य सा नवदिल्ल्यां विश्व आर्थिक मंचस्य भारत आर्थिक शिखर सम्मेलने सहभागं करिष्यति